प्रधानमन्त्रिणा रेलविभागप्रशंसित क्रीडनकादिष् भारतीय प्रातिभ परम्परयो प्रोत्साहनार्थम् श्री नरेन्द्रमोदी आभासीयोपवेशन माध्यमेन एतत्सत्रस्य आय व्यय प्रप्रक पत्रस्य प्रभावोत्पादी प्रयोगेण आधारभुतसंरचनायै चर्चा चर्चिष्यिति आराष्ट्रे वसन्तोत्सव वसन्यते

चेन्नई नगरे क्रीड्यमानायां क्रिकेट निकष स्पर्धायां सप्तदशोत्तर त्रिशतधावनांकै भारतेन इंग्लैण्डदलम् पराजितम्

भवन्तोऽपि अस्माभि सह स्रक्षाया उपायत्रयस्य सङ्कल्पं स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकदौर्य परिपालयन्त्र पाणिपादं च यथासमयं प्रक्षालयन्तु

अस्मिन्नवसरे प्रधानमन्त्री नरेन्द्रमोदी उत्तर प्रदेश बहराइचजनपदे ृश्य श्रव्यमाध्यमेन महाराज़ सुहेलदेवस्य स्मारकस्य चित्तोरा हृद निर्माणकार्यस्य च आधारशिलाम् संस्थापयत् तेन ब्रतं यत् अदय प्रभृति जायमानै निर्माणकार्यै चिकित्सा विदयालयेन च पूर्वाचलक्षेत्राणि लाभान्वितानि भविष्यन्ति सममेव एभि कार्यै कर्मान्तिकानां श्रमिकाणां च जीवनोन्नयने परिष्कारो अविष्यति अपि च पूर्वांचल बून्देलखण्ड लिंक इत्याख्येन द्रताध्वना अखिल उत्तरप्रदेशस्य विकास द्रतगत्या भविता

वसन्त पंचमी आराष्ट्रे अदय ऋत्राजवसन्तस्य आगमनात्मकं वाम्देव्या सरस्वत्या च प्राकट्योत्सवत्वेन मन्यमानाया वसन्त पंचम्या सर्वेभ्य श्रोतृभ्य वर्धापनानि अवसरेऽस्मिन् राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च ट्वीट्सन्देशमाध्यमेन वर्धापनानि प्रेषितानि भगवती वाग्देवी सरस्वती सर्वान् विद्या ब्दधि प्रसन्नादीन् यच्छत् इति उपराष्ट्रपतिना श्भाशया प्रकटिता

प्राथम्येन विद्यालयं गन्तार बाला हात्रा्खोरी नामकं विद्यारम्भ संस्कारात्मकेन संस्कारेणापि संस्कारिता भवन्ति अद्यैव चन्नापटना कर्नाटकस्थे चन्नापटना स्थासने भारतीय प्रतिभपरम्परयो प्रोत्साहनार्थ भारती रेल विभाग प्रशंसित प्रधानमन्त्रिणा तेनोक्तं यत् अनेन पदक्रमेण भारतम् आत्मनिर्भर भारत दिशि अग्रेसरिष्यति

म्ख्यमन्त्रिणा शिवराज सिंहेन मण्डलायुक्तेन सह संचर्च्य दवौ मन्त्रिणौ निरीक्षणाय घटनास्थलं प्रेषितौ धर्मेन्द्र ऊर्जा केन्द्रीय पेट्रोलियम प्राकृतिक ऊर्जा मंत्रिणा धर्मेन्द्र प्रधानेन निगदितं यत् देश स्वसामर्थ्य शक्त्या सम्प्रति ऊर्जा संग्रहणविषये वैश्विकादर्शरूपे प्रतिस्थापित श्रीप्रधानेन भणितं यत् भारतं हरित ऊर्जा परिवर्तन दिशि स्वनीतिं संस्थापयिष्यति विश्व ईंधन शिखर संय्क्त सम्मेलने संबोधयता धर्मेन्द्रप्रधानवर्येण प्रतिपादितं यत् सम्प्रति द्रवित पेट्रोलियम वायुद्रव्यस्य वृदधि षट्पञ्च शत्प्रतिशतात् नवनवतिमिता संवर्धिता तेन वाहनेभ्य उत्पन्ने प्रद्रषणविषये चापि चर्चा विहिता श्रीप्रधानेन एतदपि निगदितं यत् ऊर्जा संग्रहणशक्ति विगतेष् षट्वर्षेष् त्रयोदशग्णमिता संवृत्ता प्रधानमन्त्री बजट प्रधानमन्त्री नरेन्द्र मोदी सम्बोधयिष्यति अद्य ऐषम वर्यस्य आय व्यय संकल्पपत्रस्योपरि अन्तर्जालीय सम्मेलनमेकम्

एतदितिरिच्य आय व्यय संकल्प पत्रस्य योजनाया क्रियन्वितये तासां रूपरेखा अपि प्रस्तोष्यति

अवसरे अस्मिन् गृहमन्त्रिणा अमित अशाहेन दिल्ली आरक्षिबलस्य वीरसैनिकानां साहस संयम कार्याणि च प्रशंसितानि सममेव विषमपरिस्थितौ अपि शान्तिस्रक्षायै दिल्ली आरक्षिबलस्य भूमिकाया अपि उल्लेखो विहित केन्द्रीय गृहराज्यमन्त्री किशन रेड्डी वर्येण निगदितं यत् गणतन्त्रदिवसावसरे ट्रैक्टर यात्रायां द्रापन्नाया हिंस्र घटना सम्म्खीकरणे देहल्यारक्षिबलस्य कार्याणि श्लाघनीयानि इति

अनेन तन्त्रेण एष् क्षेत्रेष् वास्तव्या गृहादेव स्वकीया समस्या पञ्जीकारयित्वा निराकर्त् शक्यन्ते अनया परियोजनया द्वाषष्टि सेनावास परिक्षेत्रेष् विंशतिलक्षसंख्याका जना नगरपालिकाया विविधसेवाभि लाभान्विता भविष्यन्ति

देशे साम्प्रतं यावत् प्रायः सप्ताशीति लक्षजना कोरोना सूच्यौषधं प्राप्तवन्त स्वास्थ्य परिवार कल्याणमंत्रालयान्सारि विगतास् चत्र्विशतिहोरास् पञ्चत्रिंशत् सहस्त्रोत्तरचत्र्लक्षजनेभ्य सूच्यौषधं प्रदत्तम् एतदन्तरा देशे स्वस्थीभूतानां प्रतिशतं त्रि द्वि उत्तर सप्तनवतिमितं संवृत्तम् मंत्रालयान्सारि साम्प्रतं यावत् कोरोनात स्वस्थीभूतानां संख्या षट्लक्षोत्तरैक कोटिमिता जाता देशे निरन्तरं सक्रियप्रकरणानि न्यूनीभूतानि देशे विगतास् चत्र्विशतिहोरास् संक्रमणस्यास्य एकविंशत्यृत्तरैकशताधिकनवसहस्र नूतनानि प्रकरणानि सम्प्राप्तानि भारतीयायूर्विज्ञानपरिषदन्ग्णं साम्प्रतं यावत् त्रिसप्ति अधिक विंशतिकोटि जनानां कोरोना परीक्षणं सम्पन्नम् अन्त च क्रीडावार्ता चेन्नई नगरे क्रीड्यमानायां द्वितीयनिकष स्पर्धायां भारतीयदलेन इंग्लैण्डदलम् पराजितम् भारतेन इंग्लैण्ड देशाय दवयाशीत्यधिकचत्श्शत धावनांकानां लक्ष्यं दत्तम् परं ते चत्ष्षष्ट्योत्तरैक शतमेव योजयित्वा सप्तदशोत्तरत्रिशतधावनांकै पराजिता अक्षरपटेलेन पञ्चक्रीडका रविचन्द्रअश्विनेन च द्वौ क्रीडकौ पातितौ अन्तत एकैकम् अंकं संधाय उभे अपि दले तुल्ये स्त